अद्य रात्रौ सऊदीअरबियायाः रियाद नगरं सम्प्राप्य श्रीमोदी सउदी अरबियायाः फ्यूचर इन्वेस्टमेंट इनिशियेटिव नाम्नः मञ्चस्य तृतीयं सत्रम् सम्बोधयिष्यति प्रधानमंत्री तत्रत्येन नृपेण सलमान बिन अब्द्रल्लाज़िज अल सउदेन साकं द्विपक्षीयं संवादम् आचरिष्यति य्गपदेवासौं सउदी अरबिया य्वराजेन समं शिष्ट मंडल स्तरीयं मन्त्रविनिमयमपि विधास्यति प्रधानमन्त्रिणः सम्माने य्वराजेन रात्रि भोज कार्यक्रमोड़पि समन्ष्ठास्यति सउदी अरबियायाः दवितीयेयं यात्रा वर्तते प्रधानमन्त्रिणः यत्र द्वैपाक्षिक सम्बन्धान् दृढीकरणपराणि नैकानि सन्धिपत्राणि हस्ताक्षरिष्यन्ते प्रधानमंत्री एलओसी प्रधानमंत्री नरेन्द्रमोदी नियंत्रणरेखायां संलग्नैः स्रक्षाबलैः सह दीपावली महोत्सवयोजनार्थ गतदिने जम्मूकश्मीरस्य राजौरीजनपदे अगच्छत् स्रक्षाभटान् सम्बोधयन् श्रीमोदीवर्यः भारतीय स्रक्षाबलानां पराक्रमस्य प्रशंसां अकरोत् न्यगादीत् च यत् स्रक्षाबलानां शौर्य हि कारणं येन अध्नावधि असम्भव निर्णय विधाने केन्द्र प्रशासनं समर्थोऽभवत्

प्रधानमंत्री राष्ट्पतिः प्रधानमंत्री नरेन्द्रमोदी गतदिने राष्ट्रपतिना रामनाथकोविंदेन उपराष्ट्रपतिना वैंकैयानायड्ना पूर्वराष्ट्रपतिना प्रणवम्खर्जिना च समं सम्मिल्य दीपावलीमहोत्सवस्य श्भेच्छां प्रकटितवान् मेलनानन्तरं प्रधानमंत्रिणा ट्वीटर इति अन्तर्जालीय पटले मेलनस्य चित्राणि अपि प्रदर्शितानि

बैडमिण्टन् फ्रैंच म्क्त बैडमिंटन स्पर्धा मालिकायां प्रुषाणां य्ग्म निर्णायक चक्रे भारतस्य सात्विक साईराज रैंकी रेड्डी चिराग शेट्टीति प्रुषय्गलं इण्डोनेशियायाः मार्कस फरनाल्डी गिदिओन केविन सनयजा स्काम्ल्जो य्ग्मेन पराजितम् स्पर्धेयं पेरिसनगरे गतरात्रौ समन्ष्ठिता आसीत्